प्रधानमंत्री नरेन्द्र मोदी आगामिति

प्रत्यवाप्निमिति शून्यं द्वे दशमलवोत्तर चतुर्नवति प्रतिशतं यावत् विवर्धिता

अपि च अद्य भारतम् ऑस्ट्रेलियादलं च अंतरा विंशंति प्रतिविंशति स्पर्धामालिकाया द्वितीय स्पर्धा सिडनी क्रीडांगणे क्रीडयिष्यते

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीकुर्वन्तु मुखावरंक सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

षष्ठ स्तरीया वार्ता बुधवासरे भविष्यति पञ्चम स्तरीया वार्ता ह्य दिल्ल्यां विज्ञानभवने जाता सम्मेलनानन्तरं केन्द्रीय कृषिमंत्री नरेन्द्र सिंह तोमरो वार्ताहर सम्मेलने न्यगादीत् यत् न्यूनतम समर्थनमूल्यं तथैव स्थास्यते स विश्वासान्वितो दृश्यते यत् कृषका सकारात्मका सन् स्वीयान्दोलनं समाप्स्यन्ति इति कृषक कल्याणाय प्रशासनीयां प्रतिबद्धतां पुनः स्मारयता केन्द्रीयो कृषि मन्त्री समुदीरयत् यत् तेन कृषक प्रतिनिधय प्रार्थिता यत् ते तान् बिन्दुन् उल्लेखयन्तु येष् कृषक प्रति निधय विवादास्पदत्वेन प्रख्यापयन्ति

लोकसभाध्यक्ष ओम बिरला दिल्ल्यां वार्ताहरसम्मेलने प्रावोचत् यत् भवनस्य निर्माणम् आगामि शतं वर्षाणाम् आवश्यकता निधाय क्रियते तेनोक्त नवीनसंसद्धवनस्य निर्माणे एकसप्तति उत्तर नवशत कोटिरुप्यकाणा व्ययो भविष्यति कोविड कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य भारतीय संघर्ष प्रवर्धतेतराम् देशे अनारतं प्रत्यवाप्तमितौ परिष्कारो जाजायते अपरत सक्रिय प्रकरणेष्वपि अपचिति जाजायमाना वर्तते देशे सक्रिय प्रकरणानि पश्यामश्रेत् नवाशीत्यधिक षड् शताधिक नव सहम्राधिक चतुर्लक्ष संख्याकानि प्रकरणानि वर्तन्ते

आभारते नैकेषां कार्यक्रमाणाम् आयोजनं विधीयते डॉ भीमराव अम्बेडकरस्य भारतीय संविधाननिर्माणे महद्योगदानं विद्यते

क्रीडाप्रारंभ भारतीयसमयानुसारि अपराह्ने चत्वारिशदधिक एकवादने भविष्यति